प्रधानमन्त्री नरेन्द्र मोदी दृश्यश्रव्य संवाद तन्त्रमाध्यमेन प्रातः साधैंकादश वादने सर्वदलीयं सम्मेलनं संबोधयिष्यति

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सड्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त् आर्थिक सर्वेक्षणम् देशे विहितम् आर्थिक सर्वेक्षणानुसारम् आगामि वित्तवर्षे सकल गृहोत्पादस्य विकास मितिः प्रतिशतम् एकादशमिता अन्मिता अस्ति अस्मिन् प्राशासनिक व्यये वृद्धिकारणात् अर्थव्यवस्थाया विकास प्रतिशततायां परिष्कारो भविष्यति वित्तमन्त्री निर्मला सीतारमण गतवासरे लोकसभायाम् विंशत्यधिक द्विसहस्रतमैक विंशत्यधिक द्विसहस्रतम वर्षीयम् आर्थिक सर्वेक्षणं प्रस्तृतवती सर्वेक्षणे उक्तमस्ति यत् निर्यातद्वारा प्राशासनिकोपभोगे वृद्धिद्वारा च अर्थव्यवस्थायाम् अपचिति स्थगिता भविष्यति प्रवर्तमान वित्त वर्षे सकलगृहोत्पाद प्रतिशतता सपृत दशमलव सप्त प्रतिशतम अनुमिता अस्ति

उभयो सदनयो संयुक्त सत्रं सम्बोधयन् राष्ट्रपति रामनाथ कोविन्द प्रावोचत् यत् संविधानम् अस्मभ्यम् अभिव्यक्ते स्वतन्त्रताया अधिकारं प्रयच्छति सममेव एतत् अपेक्षते यत् नागरिका विधि व्यवस्थामपि तादृग् निष्ठा भावेन एव अन्पालयन्त् अत्रान्तरे राष्ट्रपतिना गणतन्त्र दिवसावसरे घटिता घटना द्भाग्यपूर्णा ख्यापिता तेन प्रोक्त यत् राष्ट्रिय ध्वजस्य अपमानं गणतन्त्रदिवसस्य चानादरं न कथमपि सहिष्येते राष्ट्रपति सविशेषं न्यगादीत यत् आत्मनिर्भर भारतस्य लक्ष्यं तदा पूर्ण भविष्यति यदा वयं कृषिक्षेत्रे आत्मनिर्भराः भविष्यामः तेनोदीरितं यत् संसद विगते सत्रे अभ्युपगतस्य कृषि सम्बद्ध विधेयक त्रयस्य उद्देश्यं कृषकाणां साहथ्योपपादनम अस्ति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 एतमेव लाभं वीक्ष्य अनेकै राजनीतिक दलै कृषि विधेयकानि समर्थितानि

अमुनोक्तं यत् संकट काले अस्मिन् प्रतिवेशि देशेभ्य भारतं निःशुल्कं कोरोणा सुच्यौषधम् उपलम्भयति इत्थं च राष्ट्रं मानवतां प्रति स्वीयम् उत्तरदायित्वं निर्वहति

स्वास्थ्यपरिवारकल्याण मन्त्रालयेन प्रोक्तं यत् विगते अहोरात्रावधौ प्राय द्विसप्तति सहस्राधिक पञ्च लक्ष संख्याका लाभार्थिन सूच्यौषधं प्राप्तवन्त